जम्मूकश्मीर स्थिति भ्रदतमा प्राथमिकविद्यालया प्न श्वो प्रभृति उद्घाटयिष्यन्ते उपराष्ट्रपतिना लिथ्आनिया संस्कृतभाषायो प्रचलितसामान्य शब्दानाम् एक लघकोष सम्प्राप्त हर्षश्च प्रकाशित रक्षामन्त्रिणा पाकिस्तानं संचेतितं यत् भारतं सर्वदैव पाकिस्तानाधिकृत क्षेत्रस्योपरि वार्ता करिष्यति न त् अन्य कास्मिंचित् विषयोपरि प्रधानमंत्री प्रधानमंत्री श्रीनरेन्द्रमोदी भूटानदेशीय द्विदिवसीय यात्रानन्तरमद्य स्वदेश सम्प्राप्त श्रीमोदिना भूटानराजधान्यां थिम्फू नगयीं रॉयलभृटानविश्वविद्यालये छात्रा अपि सम्बोधिता आसन् तेनोक्तं यत् सौहार्दभावनया एव सौख्यं प्रददाति मानवता अत विश्वं सुखमय भवेत् तर्हि विकास सर्वत्र सम्भविष्यति भारतं भूटानदेशश्च द्विपक्षीयसम्बन्धान् उत्तुंगाकाशे विवर्धनाय जलविद्युत्क्षेत्रे च सहयोगसम्वर्धनाय साहमत्यं प्रकाशितवन्तौ जम्मूकश्मीरस्थिति जम्मूकश्मीरे स्थिति अध्ना सामान्यतां याति काश्मीरोपत्यकायां अन्यत्र च विहितप्रतिबन्धा शिथिलीकृता वर्तन्ते अपरक्षेत्रेषु द्रभाषासेवा पुन समारब्धा कतिपयै स्थानीयवार्तापत्रै स्वकीयप्रकाशनमपि आशु आरब्धम् शासकीयेन प्रवक्त्रा रोहित कंसलेन स्पष्ट कृतं यत् श्वो प्रभृति उपत्यकायां प्राथमिकविद्यालया पुन उद्घाटयिष्यन्ते एतदर्थं सर्वेऽऽवश्यकप्रबन्धा तत्र कृता सन्ति रक्षामन्त्री रक्षामन्त्री राजनाथसिंह प्रतिपादितवान् यत् पाकिस्तानेन सह यदा कदा अपि वार्ता भविष्यति तदा भारतं जम्मूकश्मीरस्य तेषु क्षेत्रविषये वार्ता करिष्यति यानि क्षेत्राणि पाकिस्तानाधिकृतानि सन्ति हरियाणाम् एकस्मिन् कार्यक्रमे भाषमाण असौ न्यगादीत् यत् पाकिस्तानेन सह तदा एव वार्ता सम्भविष्यति यदा स आतंकवादसंरक्षणं प्रतिषिद्धयति कार्यक्रमोऽयं हरियाणाया पंचकुला जनपदे कालकात जनाशीर्वादयात्रां समारम्भनाय आयोजित आसीत् हर्षवर्धन स्वास्थ्यपरिवारकल्याणमन्त्री डॉ हर्षवर्धन अद्य नवदिल्ल्याम् अखिलभारतीयायर्विज्ञानसंस्थानं संप्राप्य तत्र अग्नीसात्स्थलस्य निरीक्षणं कृतवान् तेन साकं एम्स इत्यस्य निदेशकोऽपि आसीत् प्राशासकीय विज्ञप्त्यान्सारी ज्ञायते यत् ह्यो माइक्रो बायोलॉजी प्रयोगशालाक्षेत्रात् अग्निसम्भवनात् कतिपय प्रयोगशाला प्रभाविता अभवन् संस्थानस्य औषधालय रुग्णालयक्षेत्रे च कुत्रचित् क्षति न दृष्टिगता न च केऽपि ह्ताहता सन्ति

उपराष्ट्रपति लिथुआनियादेशगतेन उपराष्ट्रपतिना श्री एम वेंकैया नायडूना हिस्ट्री ऑफ लिथुआनिया इन हिन्दी इति पुस्तकं संप्राप्य अतीव हर्षप्रकाशित एकस्मिन् ट्वीट् सन्देशे असौ व्यलेखि यत् लिथुआनिया संस्कृत भाषयो सामान्यशब्दावली युक्त कोष प्रसंशाई तेनोक्त यत् प्रयासोऽयं कर्तव्य यत् द्वयो भाषयो दशसहस्रसामान्य प्रचलित शब्दा संप्रहीतव्या प्रकाशतीतव्याश्च